अद्य दिल्ल्या मुख्यमन्त्रिणा अरविन्द केजरीवाल इत्यमुना सप्ताहस्य अन्ते पिधानस्य उद्घोषणा कृता प्रधानमन्त्रिण नरेन्द्रमोदिन सूच्यौषध उत्सवस्य आह्वानस्य अनन्तरं एष् चतुर्दिवसेष् अष्टाविंशति लक्षाधिक एककोटि मितादपि अधिकेभ्यो अर्ह जनेभ्यो सूच्यौषधं प्रदत्तम् गुजरात राज्ये आतंकवादी निरोधक दल एटीएस इत्यनेन भारतीय तट रक्षक बला मेह मिलित्वा अष्टौ आतंकवादिन निगृहीता आईपीएल श्रृंखलायाम् अद्य मुम्बइयां राजस्थान रॉयल्स दिल्ली कप्टिटल्स दलयोर्मध्ये स्पर्धा भविष्यति

एतदर्थं निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्तु

भवन्त भवत्य च सरक्षाया उपायत्रयस्य संकल्पं स्वीकृत्य स्रक्षिता भवन्त् मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त्

स्वास्थ्य परिवार कल्याण मन्त्रायलेन प्रतिपादितं यत् अस्मिन् काले देशे ऑक्सीजन इत्यस्य सञ्चय पञ्चसहस्र मीट्रिकटन परिमित अस्ति अपि च दस्क्री उत्पादन क्षमता सप्तसहस्र मीट्रिकटन परिमितादपि अधिका अस्ति सममेव अस्याम् उत्पादनक्षमतायां वृद्धि अपि कृता अस्ति

अद्य दिल्ल्या मुख्यमन्त्रिणा अरविन्द केजरीवाल इत्यमुना सप्ताहस्य अन्ते पिधानस्य उद्घोषणा कृता पिधानस्य अवधि प्रतिसप्ताहे शुक्रवासरे रात्रौ दशवादनात् सोमवासरे प्रात षड्वादन पर्यन्तं भविष्यति अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् मुख्यमन्त्री अरविन्द केजरीवाल प्रोक्तवान् यत् अस्मिन् पिधानस्य अवधौ व्यायामशाला जिम इति बृहद् विपणय मॉल इति स्पा इति च पूर्णरूपेण पिहिता भविष्यन्ति तत्रद्वचलच्चित्र गृहाणि त्रिंशत् प्रतिशतस्य धारणशक्ते सह विवृतानि भविष्यन्ति तेन आश्वासितं यत् इदानीम् अपि महानगरे स्थिति नियन्त्रणाधीना अस्ति स निवेदितवान् यत् महामार्या विषमे काले उपचारार्थं कस्मिंशिद चिकित्सालयविशेषे प्रवेशार्थं जनाआप्रह न करणीय मुख्यमन्त्रिणा संसूचितं यत् दिल्ली सर्वकारेण सर्वे सार्वजनिक चिकित्सालया निर्दिष्टा यत् चिकित्सालयेष् रोगीणां कृते शव्यानां संख्यायां वृद्धि करणीया अवधेयास्पदम् अस्ति यत् अद्य दिल्ल्यां उपराज्यपालेन दिल्ल्याः स्वास्थ्य मन्त्रिणा च साकम् उपवेशनस्य अनन्तरं अयं निर्णय गृहीता कोरोना स्थिति केन्द्रीय स्वास्थ्यमन्त्रालय प्रत्यपादयत् यत् साम्प्रतं यावत् देशे प्राय चतुश्चत्वारिंशत् लक्षोत्तर एकादशकोटि मितेभ्य लाभार्थिभ्य कोविड् ऊनविंशति संक्रमण प्रतिरोधि सुच्यौषधानि प्रदत्तानि विगतासु चतुर्विंशतिहोरासु द्विलक्षमितादपि अधिकानि नूतनानि कोरोणा विषाणो प्रकरणानि समक्षम् आगतानि अनेन सहादेशे इदानीं यावत् संक्रमितानां कुलसंख्या समेध्य प्रायश चत्वारिंशत् लक्षाधिक एककोटि मिता संवृत्ता साम्प्रतं स्वस्थता प्रतिशतता अपचीय अष्टाशीति दशमलव एकत्रिंशत् मिता अस्ति एतद् अतिरिच्य गते अहोरात्रे एव देशो अष्टत्रिंशदृत्तर अधिक एकसहस्र कोरोणा पीडिता प्राणान् अत्यजन् अध्नावधि देशे कोरोणा कारणात् मृत्युम् उपगतानां संख्या समेध्य त्रयस्सप्तति सहस्राधिक एकलक्ष मिता संजातास्ति देशे ह्य टीका उत्सवस्य चतृर्थे दिवसे लक्षाधिका जना कोरोना सूच्यौषधं प्राप्तवन्त स्वास्थ्य परिवार कल्याण मन्त्रालयेन संसुचितं यत् अस्य विशेष सुच्यौषधस्य अभियानस्य अन्तिमे दिवसे एकत्रिंशत् लक्षाधिका जना इदं सुच्यौषधं प्राप्तवन्त अवधेयासपदम अस्ति यत् प्रधानमन्त्रिण नरेन्द्रमोदिन सुच्यौषध उत्सवस्य आह्वानस्य अनन्तरं एष् चतुर्दिवसेष् अष्टाविंशति लक्षाधिक एककोटि मितादपि अधिकेभ्यो अर्ह जनेभ्यो सुच्यौषधं प्रदत्तम् संस्कृतवार्ताया संस्करणमिदं इदानी आकाशवाणीत प्रसार्यते

ग्जरात ए टीएस ग्जरात राज्ये आतंकवादी निरोधक दल एटीएस इत्यनेन भारतीय तट रक्षक बला प्रह मिलित्वा अष्टौ आतंकवादिन निगृहीता एते आतंकवादिन भारतीय सम्द्री क्षेत्रे जखाऊ तटस्य समीपे स्वनौकाभि सह प्रगृहीता अनयो दलयो संयुक्ताभियाने आतंकवादिभ्य त्रिंशत् किलोप्राम परिमित हिरोइन इति प्राप्त अवधेयास्पदम् अस्ति यत् द्वारका जनपदस्य आरक्षिकल जैकात मादक पदार्थस्य आनयनस्य सूचना सम्प्राप्ता तदनन्तर एटीएस इति दलेन विशेष कार्यबला जिह कार्यवाही कृता आसीत् सुच्यौषध अनुमति केन्द्रीय सर्वकारेण प्रतिपादितं यत् केन्द्रीय औषध नियामक प्राधिकरणं विदेशी सुच्यौषधस्य आवेदनस्य उपरि त्रिदिवसेष् निर्णय ग्रहीष्यति सममेव केन्द्रीयसर्वकारेण विविध संस्थाभि स्वीकृतानां सुच्यौषधानां अपि च विश्वस्वास्थ्य संघटनेन स्वीकृतानां सूच्यौषधानां आपातकालीन प्रयोगस्य अन्मतिं प्रदानार्थं नियामका दिशानिर्देशा अपि प्रदत्ता रक्षामंत्री रक्षामन्त्री राजनाथ सिंह प्रोक्तवान् यत् भारतीय वायुसेना इत्यनया भावि परिस्थितिम् अभिलक्ष्य योजनाया निर्माणं अपि च क्षमतायां संबर्दनं करणीयम् रक्षामन्त्री पूर्वी लद्दाख क्षेत्रे अल्पसमये एव विकासार्थं धन्यवादं ज्ञापितवान् रक्षामन्त्री अद्य नवदिल्ल्यां भारतीय वायु सेना इत्यस्या द्विवार्षिकी संगोष्ठी सम्बोधयन् इमे विचारा प्रकटितवान् अत्र तेन वायुस्खिलानां भविष्योन्मुखी कार्याणि प्रशंसतिानि स प्रोक्तवान् यत् रक्षाक्षेत्रस्य संरचनात्मक विकासे अपि आत्मनिर्भरतां प्रोत्साहयित् महती आवश्यकता अस्ति

इयं कार्यक्रमस्य षड्सप्ततितमा श्रृंखला भविष्यति

सममेव जनाः निःश्ल्क संख्यायाः दर्भाष प्रयोगं कृत्वा अपि हिन्दी भाषायाम् आंग्लभाषायां वा सन्देशं प्रदात् समर्थाः सन्ति

शनिवासरे षड् जनपदेष् पञ्चचत्वारिशत् आसनेष् मतदानं भविष्यति अन्ते च क्रीडा वार्ताः इण्डियन् प्रीमियर लीग इति क्रिकेट स्पर्धामालिकायां ह्य क्रीडिते एकस्मिन् द्वन्द्वे रॉयल चर्टीजर्स बैंगलूरु इत्येत् दलेन सनराइजर्स हस्त्रीबाद इत्येतत् दलं षट् अंकाभ्यां पराजितम्